कांग्रेसदलेन राजनैतिक संकट प्रकरणमिदं लोकसभायां सम्त्थापितम् शीर्षन्यायालयेन स्वीय पञ्जीकरण कार्यालये भ्रष्टाचरणं निरोदधं निर्णयो विहित

भाजपादलं प्रति समर्थनं प्राकटयत् अत्रान्तरे कांग्रेस दलस्य वरिष्ठ नेतृभि विद्रोहि विधायकै समं समाकारितोपवेशनानन्तरं एतेषां त्यागपत्राणि नैव स्वीकरिष्यन्तेइति निर्णयो विहित अपरत्र राजनैतिक संकट स्थैतस्योत्तदायी मात्रमेकं भाजपादलमिति प्रोक्तवान् वार्ताभिकरणै सार्ध सम्भाषमाण दलनेता सिद्धारमैया अथोक्तं राज्ये सत्ताधिरूढं प्रशासनं विखण्डयित्ं प्रयासं क्रूते भाजपादलम् य्गपदेवासौ न्यगादीत् यत् विद्रोहि विधायकास्तोषयित् मन्द्रिमण्डले तेषां समावेश समाश्वासन प्रदान प्रस्सरं तान् प्नरपि दले समानेत् प्रयत्नमाचरन्ति दलनेतार एकविंशति मन्त्रिणां त्यागपत्रार्पणस्य सूचनापि अमुना प्रख्यापिता तत्रैव कांग्रेसदलेन राजनैतिक संकट प्रकरणमिदं लोकसभायां सम्त्थापितम् रक्षामन्त्रिणा भाजपानेत्रा च राजनाथसिंहेन भणितं यत् शासनाधिरूढयो संय्तिदलयोर्मध्ये राजनैतिक संकटस्य स्थिति भवेत् सौहार्दो वा भवेत् भाजपादलं एतदात्मानं पृथक् करोति

सूचनेयं श्रम मन्त्री सन्तोष क्मार गंगवार लोकसभायामद्य लिखितोत्तरे प्रकाशयत् अमुनोक्तं यत् अशेषदेशत एतादृक्समस्योन्मूलनाय बाल जीवनं च संरक्षितुं प्रशासनं प्रयत्नरतमस्ति

उच्चतम न्यायालय शीर्षन्यायालयेन स्वीय पञ्जीकरण कार्यालये भ्रष्टाचरणं निरोद्ध् निर्णयो विहित एतदर्थ सी बी आई दिल्यारक्षिबलस्य वरिष्ठाधिकारिणश्च तदीय कार्यालये नियोक्ष्यन्ते इति न्यायालयेन निर्णीत

प्रकरणमवलम्ब्य बम्बई उच्च न्यायालेन आरक्षण प्रदान निर्णय श्रावित आसीत् निर्णयमिमं समाहवयन्तीम् याचिकामधिकृत्य वादश्रवणाय शीर्षन्यायालयेन स्वीकृति प्रदत्ता प्रकरणमवलम्ब्य वादश्रवणं ज्लाई द्वादश दिनांके भविष्यतीति स्निश्चित शीर्षन्यायालयेन जम्मकश्मीरे संघर्षोल्लंघनम जम्मूकश्मीरस्य राजौरी जनपदस्थे नौशेरा क्षेत्रे अद्य प्रात पाकिस्तानेन कृत संघर्ष विरामोल्लंघने नागरिकैको व्रणित रक्षा स्रोतोभिर्जापितं यत् प्रात षड्वादने अकारणमेव पाकिस्तानीय सैनिकै स्थानीय वासिन लक्ष्यीकृत्य प्रहारा समारब्धा भारतीय सैनिका अपि यथोचितं प्रत्य्त्तरन्ति उत्तरप्रदेश दुर्घटना उत्तरप्रदेशस्य आगराया यम्ना राजमार्गे अद्य प्रात द्रापादितायां द्र्घटनायां नवविंशति जना मृता

सूत्रान्सारि जम्मो भगवती नगरस्थात् यात्री निवास आधार शिविरात् तीर्थयात्रिणां न कश्चिदपि समूहः गमनाय अन्मतः